एतयोः उभयोः राज्ययोः विधानसभा निर्वाचनस्य द्वितीय चरणार्थं प्रचाराभियानं ह्यः सांयकाले समाप्त

भवन्त अपि अस्माभि सह स्रक्षाया उपाय त्रयस्य सङ्कल्प स्वीक्वन्त् मुख आवरकं सन्धारयन्त् सामाजिक दरतां पालयन्तु पाणि पादं च यथा समयं प्रक्षालयन्त्

एतयोः उभयोः राज्ययोः विधानसभा निर्वाचनस्य द्वितीय चरणार्थं प्रचाराभियानं ह्यः सांयकाले समाप्त् असमे निर्वाचनाय नवत्रिंशत् आसनेष् पञ्चचत्वारिंशदधिक त्रिशतं प्रत्याशिनः सन्ति येष् षड्विंशति महिलाः सन्ति पश्चिमबंगाले निर्वाचनाय त्रिंशत् आसनेष् एकसप्तत्यधिक एक शतं प्रत्याशिनः सन्ति येष् नवदश महिलाः सन्ति सममेव असम पश्चिमबंगालयोः तृतीय चरणार्थं अपिच तमिलनाडु केरलयोः केन्द्रशासित प्रदेशे प्ड्वेर्य्यां च प्रथमचरणार्थं प्रचाराभियानं द्र्तगत्या प्रचलति प्रधानमन्त्री नरेन्द्रमोदी ह्यः निर्वाचन प्रचाराय दक्षिण राज्य केरल तमिलनाडु पुडुचेरीः गतवान् तमिलनाडु केरलयोः पुड्चेर्य्यां च प्रथम चरणार्थं मतदानं अग्रिम मासस्य षड् दिनांके भविष्यति पश्चिमबंगाले तृणमूल कांग्रेस शासित प्रशासनस्य परीक्षा अस्ति तथा च असमे भाजपा दलीय प्रशासनं अपि परीक्षणाय अस्ति कटिबद्धम् बंगाले नन्दीग्राम निर्वाचन विधानसभा क्षेत्रं महत्वावहं सिध्यति तत्र हि राज्यस्य मुख्यमन्त्रिणः ममता बनर्जिनः संघट्टः भाजपा दलस्य श्वेन्द् अधिकारिणा सह अस्ति

स्वास्थ्य परिवार कल्याण मन्त्रालयान्सारेण होलीपर्वणः अवसरे अपि प्रायः द्वयाशीति सहम्राधिक पञ्चलक्षजनाः कोरोना प्रतिरोधी सूच्यौषधं प्राप्तवन्तः देशे साम्प्रतं यावत् स्वस्थतामितिः अष्ट एक दशमलवोत्तर चतुर्ण्णवतिमिता वर्तते

असौ ताजिकिस्तानस्य राजधान्यां द्शम्बे इत्यस्मिन् हार्ट ऑफ एशियाया नवम त्रिस्तरीय सम्मेलने प्रोक्तवान् यत् अफगानिस्ताने स्थायि शान्ति विनिर्माणाय हितधारका प्न शान्ति तन्त्रे कार्यम् करिष्यन्ति येन अस्मिन् देशे शान्ति स्थापिता भवेत् अवधेयास्पदं वर्तते यत् हार्ट ऑफ एशिया इस्ताम्ब्ल प्रक्रियाया स्थापना एकादशाधिक द्विसहस्त्रतमे वर्षे अभवत् अस्मिन् भारतस्य भूमिका महत्वपूर्णा अस्ति सरस्वती सम्मानम् मराठीलेखक डॉशरण्कुमार लिम्बाले सनातन इति पुस्तकस्य कृते द्विसहस्र विंशति वर्षीयं सरस्वती सम्मानं प्राप्स्यति

सनातन इति उपन्यासं दलितसंघर्षस्य ऐतिहासिकी रचना वर्तते